भारत पाकिस्तान कश्मीर विदेशेष् पाकिस्तानीय दूतावासेष् स्थापितानि तथोक्तानि कश्मीर सम्बद्धानि प्रकोष्ठानि विरूध्य कार्याचरणर्थ कतिपया देशा भारतेन अध्यर्थिता गतदिने लोकसभायां लिखितोत्तरमाध्यमेन विदेशमन्त्रिणा श्री म्रलीधरेण एतत् संसूचितम्

स्चनाप्रसारण मन्त्रिणा प्रकाश जावडेकरेण सूचितं यत् संसदि चत्रशीति संख्याका अन्सूचितजातीया सप्तचत्वारिंशत् च अन्सूचितजातीया सदस्या वर्तन्ते

झारखण्ड निर्वाचनम् झारखण्ड विधानसभा निर्वाचनस्य दवितीय चरणार्थ नैर्वाचनिक प्रचाराभियानम् अद्य पूर्णतां गमिष्यति

मतगणना अस्य मासस्य त्रयोविशे दिनांके भविष्यति

खरतोउम स्थित भारतीय दूतावास द्वारा प्रसारितायाम् एकस्यां विज्ञप्त्यां निगदितं यत् अस्या द्र्घटनाया अनन्तरं षोडश भारतीया विल्प्ता सूच्यन्ते अस्यां द्र्घटनायां प्रधानमन्ष्ट्रिणा द्ःख प्रकटितः तेनोदीरितं यत् भारतीय दूतावास पीडितेम्य सर्वसम्भवं साहाय्यम् उपपादयति

दूरभाष संकेत वर्तते दवे चत्वारि नव नव दवे एकम् नव एकं सप्त चत्वारि सप्त एकम् इति